राष्ट्रपतिना श्रीरामनाथकोविन्देन श्रीमोदिन निरामयाय प्रसन्नतायै राष्ट्रसेवायै च श्भकामना वितरिता

असौ निगदितवान् यत् नागरिका राष्ट्रनिर्माणस्य तस्य द्रष्टिकोणस्य सफलतायै आशान्विता आश्वस्ता च सन्ति

तेन सूचितं यत् अस्य मासस्य सप्तविंशे दिनांके महात्म गान्धिन सार्द्धेकशततम जन्ममहोत्सवे स्लोवेनियादेश तस्य स्मृतौ प्रष्टीमुद्रांकनमेक म्द्वाटयिष्यति जम्मुकश्मीरम अमितशाह गृहमन्त्रिणा अमितशाहेन प्रत्यपादि यत् जम्मूकश्मीरे सप्तत्तयुत्तर त्रि शत संख्याकस्य अन्च्छेदस्य पंचत्रिंशद् ए इत्यस्य च प्रावधानानाम् अपसारणानन्तरं तत्र न काचिदपि अप्रिया घटना घटितास्ति तत्र राज्ये शान्तिरेव वर्तते

बसपाध्यक्षा बहुजन समाज दलाध्यक्षा मायावती अद्य कांग्रेसदलं प्रहरन्ती प्रावोचत् यत् कांग्रेसदलेन साप्रेडं प्रमाणितं यत् तस्मिन् दले विश्वासं कर्त्त् नैव शक्ष्यते

ट्रम्प ईरानदेश अमेरीकाया राष्ट्रपतिना डोनाल्ड ट्रम्पेण उक्तं यत् अस्य मासस्य अन्ते न्यूयॉर्के संय्क्तराष्ट्र महासभाया उपवेशनावधौ ईरानदेशीय समकक्षेण हसन रूहानीत्यम्ना सह तस्य मेलनं न निर्धारितम्